एतदर्थ निवेद्यते यत् असावधानतायाः आचरणं मा व्यवहरन्त् सममेव अष्टादश वर्षात् अधिकवयैः सर्वै जनै सूच्यौषधं स्वीकरणीयम्

रक्षामन्त्री रक्षामन्त्री राजनाथ सिंहज़ प्नरुक्तवान् यत् सशस्त्र सैन्य बलैज़ नागरिक प्रशासनस्य सर्वा आवश्यकी सहायता कर्तव्या सममेव रक्षामन्त्रिणा रक्षामंत्रालयस्य त्रयाणां सैन्य बलानां च अधिकारिणः निर्दिष्टा ा यत् ते विभिनाना कृत उपायाना प्रगते ज़ अपि अवेक्षण क्वन्तु श्रीमता सिंहेन इमे विचारा ा ा स स्त्र सैन्य बलानां रक्षा मंत्रालयस्य च दृश्य श्रव्य माध्यमेन जाते समीक्षोपवेशने प्रकटिता ज़ आसन् अस्य उपवेशनस्य प्रमुख प्रयोजन कोविड महामारीं विरुध्य भारतं दृढीकर्त्म् आसीत्

उपवेशने रक्षामंत्री प्रतिपादितवान् यत् डीआरडीओ इत्यनेन संघटनेन लखनऊ नगरे पञ्चशतानां शय्याय्तानां क्षमताया ज़ चिकित्सालयस्य संस्थापना कृता अस्ति यत् आगामिष् द्वित्रेष् दिनेष् उपयोगार्थं सिद्धः भविष्यति

अस्मिन् अभियाने प्राणवायुयुतान् क्रायोजेनिक धारकान् सम्बद्ध चिकित्सकीय उपकरणानि च भारतम् आनेत् भारतीय नौसैन्यबलस्य सप्त पोताः अभिनियोजिताः

एष् आईएनएस तलवार इति पोतः चत्वारिंशत् मीट्रिक टन परिमितस्य तरल चिकित्सकीय प्राणवाय्म् आदाय स्वदेशाय प्रस्थितः अस्ति

प्रथमे क्षेपे सार्धैकलक्षं सूच्यौषधानि भारतेन सम्प्राप्तानि देशे कोरोना संक्रमणं रोद्वुम् इद तृतीयं सूच्यौषधम् अस्ति ध्यातव्यम् अस्ति यत्सद्यः एव भारतस्य औषधि महानियंत्रकेन अस्य सूच्यौषधस्य आपद्कालिक प्रयोगार्थं स्वीकृतिः प्रदत्ता आसीत् इदं सूच्यौषधं भारते रूस देशीय सूच्यौषधस्य भागधारी संस्थां डॉ रेड्डीज प्रयोगशालां समर्पितम् आसीत् अस्मिन् अवसरे भारते रूसदेशस्य राजदूतेन निकोले कुदाशेव इत्यनेन अपि रूसदेशीय सूच्यौषधस्य भारते संप्राप्ते हर्षः प्रकटितः अस्ति दिल्ली पूर्णपिधानम् गतदिने दिल्ल्याा मुख्यमन्त्रिणा राष्ट्रिय राजधानी क्षेत्रे पूर्णपिधानस्य अवधिः एकसप्ताहार्थं विवर्धितः अवधेयास्पदमस्ति यत् अप्रैल मासस्य ऊनविंशतितमे दिनांके अत्र एक सप्ताहाय पूर्णपिधानम् लॉकडाउन इत्यस्य उद्घोषणा कृता आसीत् यत् कालान्तरं मई मासस्य तृतीय दिनांक पर्यन्तं विवर्धितम् आसीत्